श्री मोदी न्यगादीत् यत् नूत्नं संसद् भवनं प्रवर्तमानशताब्दे भारतस्य आकांक्षा प्रपूरयिष्यते प्रशासनम् ब्रते यत् परिष्कृतं कृषिविधेयकं कृषकाणां हितं ध्यात्वा पारितम् अस्ति कोरोनातः स्वस्थीभूतानां संख्या इदानीं चत्र्णवति दशमलव सप्त चत्ः मिता वर्तते

जम्मू कश्मीरे जनपद विकास परिषदः निर्वाचनानां पंचमचरणात्मकं मतदानं सम्पन्नम्

अत्रोपलक्ष्ये विभिन्ना धर्मग्रुव सर्वधर्म प्रार्थना विहितवन्त अत्रावसरे श्री मोदी न्यगादीत् यत् नूत्नं संसद भवनं तादृक्स्थानं भविता यत्र प्रवर्तमानशताब्दे भारतस्य आकांक्षा प्रप्रयिष्यन्ते भवनमिदं आत्मनिर्भर भारत निर्माणस्य साक्षित्वेन भविष्यति प्रधानमंत्री प्रावोचत् यत् नाहं कदापि तत्क्षणं विस्मरिष्यामि यदा चत्र्शोतरदविसहस्रतमे वर्ष प्रथमं तावत् अहं संसद्भवनं ससम्मानं नत्वा प्रविष्टवान् प्रधानमन्त्रिणोक्तं यत् अत्याध्निक स्विधा सम्वलितं नूतनं संसद् भवनमिदं सांसदानां कौशलवर्धने सहायकं सेत्स्यति अवसरेअस्मिन् लोकसभायाः अध्यक्षः ओम् बिरला राज्यसभायाः उपसभापतिः हरिवंश नारायणसिंह गृहमन्त्री अमितशाहः इत्यादयः नेतारः अपि केन्द्रियमन्त्रिणः सांसदाश्च उपस्थिताः आसन् प्रधानमन्त्रिणा प्रोक्तं यत् भवनमिदं भारतस्य आधारभूतविचाराणां प्रतीकात्मकं भविष्यति इति लोकसभा अध्यक्ष ओम बिरला समारोहं समबोधयत् अब्रवीत् यत् साम्प्रतिके अस्मिन् संसदभवने नासीत् आधारभूतस्य परिवर्तनविस्तारस्य काचित् सम्भावना अयं हि कारणं नृतनसंसदभवननिर्माणस्य आवश्यकता आसीत् भवदभि ज्ञेयं यत् नवे भवननिर्माणकार्ये एकसप्तत्य्तर नवशतं कोटि धनराशे व्ययो भविता त्रिकोणाकारगतस्य एतन्नूतन भवनस्य सज्जता भारतीय संस्कृति क्षेत्रीय कला शिल्प वास्त्कलानां विविधरूपान्ग्णं भविता निर्माणे हरित प्रौद्योगिक्या प्रयोगो विधास्यते पर्यावरणान्कुलितं भविष्यति भवनम् तोमरः प्रशासनम् ब्रूते यत् परिष्कृतं कृषिविधेयकं कृषकाणां हितं ध्वात्वा पारितम् अस्ति नवदिल्याम् अद्य वार्ताहरान् समबोधयत् कृषिमन्त्री नरेन्द्रसिंह तोमरः न्यगादीत् यत् कृषकाः न हि केवलं खाद्यान्न आपणे एव प्रत्युत कुत्रचिदपि नैजम् उत्पादं निजनिर्धारितमूल्ये विक्रेत् समर्हन्त् इति निधाय कृषिविधेयकं संशोधनं विहितमासीत् प्रशासनं अब्रवीत् यत् संशोधितं विधेयकमवलम्ब्य कृषकैः समं सविस्तरं परिचर्चार्थ वयं तत्परा स्मः सममेव श्रीतोमरः एतदपि प्रत्यपाययत् यत् केन्द्रं कृषकान् यथासम्भवं परामृशति यत् नूतन विधेयकेन न्यूनतम समर्थन मूल्ये न कश्चित् द्वष्प्रभावो भविष्यति अत्र सन्दर्भे विचार विनिमयं विधात् प्रशासनेन कृषकसंगठनेभ्यः प्रस्तावः प्रेषित आसीत् किंच कृषकप्रतिनिधिभिः प्रस्तावोयं निराकृतः

स्वस्थताप्रतिशतता संवध्य चतृर्णवति दशमलव सप्त चत्ः परिमिता विगते अहोरात्रे भूयोपि एकत्रिंशत्सहस्रं महामार्या न्तनानि प्रकरणानि पृष्टिंगतानि अदयावधि संक्रमणग्रस्तानां संख्या आहत्य सप्तषष्टिसहस्रोत्तर सप्तनवतिलक्षमिता संवृता स्वास्थ्यमंत्रालयेन विज्ञापितं यत् विगतास् चत्र्विशतिहोरास् द्वादशाधिकचत्ःशतं जना प्राणै वियुक्ता एवं इदानीं यावत् विषाणो पीडिता एकचत्वारिंशत्सहस्रोत्रैकलक्षतोपि अधिका जना मृत्य्म्पगता तट्रैव भारते साम्प्रतं सक्रियप्रकरणानां संख्या भ्योपि दविसप्तति सहस्रोतर त्रिलक्षमिता विद्यते एतदतिरिच्य देशे अध्नावधि व्रिपंचाशत्सहस्रोतर द्विनवतिलक्षं जना स्वास्थ्यलाभम् अवाप्ताः विगते रात्रिंदिवे पंचविंशत्य्तर सप्तशताधिक सप्तत्रिंशत् सहस्रं संक्रमिता चिकित्सावकाशं गता

सूचनानुसारि तत्र एकवादनं चत्वारिंशत् दशमलव दवि सप्तमितं मतदानं समंकितम् अस्मिन् चरणे सप्तत्रिंशत आसनेभ्यः मतदानं अभवत् एतेष् सप्तदश कश्मीरोपत्यकायां अथ विंशति आसनानि जम्मूसंभागस्य आसन् ध्यातव्यमस्ति यत् अद्यावधि जनपद विकास परिषदः नवत्यधिक शतस्य आसनानां कृते मतदानानि सम्पूरितानि अवशिष्टेभ्यः नवति आसनेभ्यः मतदानानि आगामि दिसम्बर मासस्य द्वाविंशति दिनांके भविष्यति कोरोणा महामार्याः प्रभावं आलक्ष्य तत्र आवश्यकाः प्रबन्धाः प्रकल्पिताः सन्ति

अपि च हृदयेन एतस्मात् मुक्तिः लक्षितमस्ति

त्रिनवत्यधिक एकोनविंशतितमस्य वर्षस्य अक्टोबर मासस्य द्वादशतालिकायाः आरभ्य अद्यावधि सार्ध एकोनविंशतिः लक्ष्यादधिकानि प्रकरणाणि पंजीकृत्य तेष् सपाद एकोनविंशति लक्ष्यात्मिकानि प्रकरणानि समाहितानि प्रायः आन्तर्जालीय माध्यमेन समायोजितेऽस्मिन् कार्यक्रमे गृहराज्यमन्त्रिणा नित्यानन्दरायेण कथितं यत् सर्वकारः बालानां नारीणां च सशक्तिकरणे बद्ध परिकरः अस्ति

श्री सिंहः उक्तवान् यत् साईबर सिक्योरिटी इति अन्तर्जालीय सुरक्षा सैनिकानाम् औषधिव्यवस्था च अस्मत्कृते अदयतनीया मुख्या समस्या वर्तते